प्रधानमन्त्री नरेन्द्रमोदी श्व प्रातकाले दृश्य श्रव्य परान्तर्जालीय माध्यमेन विश्व भारती विश्वविद्यालयस्य शान्ति निकेतनस्य शताब्दि समारोहं सम्बोधयिष्यति केन्द्रशासिते जम्मूकश्मीरे जनपद विकास परिषद अशीत्यधिकद्वशितं आसनेष् अद्यावधि षट्सप्तति अधिक द्वि शतं आसनेभ्य परिणाम घोषित तत्र भारतीय जनता पार्टी इत्यनेन दलेन अधिकानि चत्सप्तति आसनानि विजितानि

कोरोनामहामार्या स्वस्थतामानम् देशे पंचनवति दशमलव षड् नवपरिमितम् अस्ति

प्रधानमन्त्रिण अनेन निर्णयेन नवकोट्याधिक कृषका लाभान्विता भविष्यंति श्रीमोदिना कार्यक्रमस्यास्य आयोजनावसरे भिन्न भिन्न राज्येभ्य षड्कृषकै सह वार्तालापोऽपि विहित कृषकै पीएम किसान इति विषयिक स्वान्भूत्य प्रधानमन्त्रिणा सह वितरिता प्रधानमन्त्रिणा च कृषिहिताय नीतनीतिष् प्रकाशो पातित अनया योजनया लघ्भ्य सीमांतकृषकेभ्यश्च प्रतिवर्ष षड् सहस्र रुप्यकाणां वित्तीयलाभ प्रदीयते दानं च साक्षात् लाभार्थिन वित्तकोषे एव संदीयते

ध्यातव्यमस्ति यत् प्रधानमन्त्री अस्य विश्ववदयालयस्य कुलाधिपतिः वर्तते

ध्यानास्पदं वर्तते यत् अस्य विश्वविद्यालस्य आधारशिला गतशताब्दस्य एकविंशति तमे वर्ष ग्रुदेव रविन्द्रनाथटैगोर वर्येण स्थापिता गतशताब्दस्य एकपञ्चाशत्तमे वर्ष संसद अधिनियमेन अयं केन्द्रियविश्वविद्यालय एवं राष्ट्रियमहत्वस्य संस्थानं च घोषितम्

तत्र भारतीय जनता पार्टी इत्यनेन दलेन अधिकानि चत्सप्तति आसनानि विजितानि तत्रैव जम्मू कश्मीर नेशनल कांफ्रेंस इति दलं सप्तषष्टि आसनानि जित्वा दवितीयं स्थानं लब्धवान् एकोनपञ्चाशत् आसनेष् निर्दलीय प्रत्याशिन सफलतां प्राप्तवन्त अस्मिन् निर्वाचने महबूबा मुफ्ती महोदयाया पीप्ल्स डेमोक्रेटिक पार्टी इति दलेन सप्तविंशति आसनानि प्राप्तानि तत्र कांग्रेस दलेन अद्यावधि षट्विंशति पदेष् सफलता प्राप्ता अवसरेऽस्मिन् जम्मू प्रान्ते वार्ता सम्मेलनं उदबबोधयन् भारतीय जनता पार्टी इत्यस्य दलस्य वरिष्ठ नेत्रा अन्राग ठाक्रेण डीडीसी परिणामस्य स्वागतं कृतम्

अथ च दलस्य वरिष्ठनेता रविशंकरप्रसाद प्रोक्तवान् यत् अस्य विजयस्य श्रेय उत्साह वर्धिकाये सफलताये रेन्द्रमोदिन नेतृत्वे चलायमानस्य अस्य सर्वकारस्य नीतिं ृष्टिकोणं प्रति मुद्रापयति अस्मात् परिणामात् केन्द्रस्य नीतिष् काश्मीराणां जनानां प्रबल विश्वास वरिवर्धते इति प्रतिप्ष्टिं प्राप्नोति तेन निगदितं यत् परिणामानन्तरं अस्य प्ष्टि अभवत् यत् गुपकार एलायंस इति संघठनम् भारतीय जनता पार्टीदलस्य लोकप्रियताया साम्यत्वं कथमपि कर्त् न शक्नोति इति

कोविड अपडेट देशे कोरोणास्वस्थताप्रतिशतता संवध्य पञ्चनवति दशमलव षट् नव परिमितम् अस्ति

स्वास्थ्यमन्त्रालयान्सारे स्वस्थीभूतानां जनानां संख्या संवर्ध्य त्रिषष्टिसहस्राधिक षण्णवतिलक्षमिता सञ्जाता सम्प्रति देशे संक्रमणग्रस्तानां क्लसंख्या इदानीं नवाशीति सहस्राधिक द्विलक्षमिता विद्यते विगत रात्रौ देशे त्रयस्त्रिंशदाधिकत्रिशतम् विषाणुदुष्प्रभाविता कालकवलिता अभवन् भारतीय आय्र्विज्ञान अन्संधान परिषद विगते चत्र्विशतिहोरासु अप्रायश अष्टनवतिसहस्राधिक दशलक्षमितानां रोगिणां परीक्षणं अभवत् इति उक्तम् योगी कषि विधेयकम् उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन प्रदेशस्य राजधान्यां कृषकान् संबोधयन् भणितम् यत् नूतनानि कृषिविधेयकानि कृषकेभ्य अतिलाभदायकानि सन्ति परमु ये जना देशस्य कृषकाणाञ्च हितं नेच्छन्ति ते विधेयकानां विरोधं कुर्वन्त सन्ति तेनोक्तम् कैश्चित् जनै कृषका मार्गभामिता क्रियन्ते तेन अग्रे उक्तम् यत् कृषिविपणानि पूर्ववत् कार्य क्र्वन्ती स्थास्यन्ति न्यूनतम समर्थनमूल्यमपि न निराक्रियते अत कृषिविधेयकै कृषकाणां कथमपि हानि न भविष्यति श्रीयोगिना कथितम् यत् प्रधानमन्त्रिण मोदिन नेतृत्वधायिना अनेन सर्वकारेण स्वतन्त्रानन्तरं कृषकेभ्य सर्वाधिक कल्याणकारी योजनास्वनीतौ योजिता

प्रदेशेऽस्मिन् कृषिविश्वविद्यालया कृषिविज्ञानकेन्द्राणि च कृषकाणाम् उत्थानाय पूर्णत प्रयासरता सन्ति अयं सर्वकार महान्तं कृषिनेतारं स्वर्गीय श्री चौधरीचरणसिंहम् अन्गन्ता अस्ति

तै स्वशासनकाले कृषकाणां लाभाय अनेका नीतय समारब्धा

श्रीसिंहेन अग्रे उक्तं यत् अयं पूर्वप्रधनमनत्री देशस्य सर्वाधिकसम्मान भाजनेष् कृषिनेतृष् अग्रणी आसीत्